उभाभ्यामपि देशाभ्यां पारस्परिक संबन्ध स्दृढीकरणार्थ नैकानि सन्धिपत्राणि हस्ताक्षरै प्रमाणयिष्यन्ते नवदिल्ल्याम् अद्य यूरोपीय संसत्सदस्या प्रधानमन्त्रिणं नरेन्द्र मोदिनम् अमिलन् जम्मू कश्मीरे विद्यालयीय शिक्षा परिषद आगामि परीक्षाणां सुचारु संचालन व्यवस्थायै प्रबन्धा प्रकल्पिता

श्री मोदी अस्यां रात्रौ रियादं सम्प्राप्स्यति असौ श्व सउदी अरबस्य भावि निवेशोपक्रमाधिवेशनस्य तृतीय ं सत्र संबोधयिष्यति सउदी राज्ञा सलमान बिन् अब्दुलजीज़ अल् सौदेन सह द्वि पाक्षिक संभाषणम् अन्ष्ठाय श्री मोदी तत्रत्य राजकूमारेण मोहम्मद बिन सलमानेन समं प्रतिनिधि मण्डल स्तरीयां परिचर्चा विधास्यति सउदी राजक्मार अस्मदीय प्रधानमन्त्रिण सम्माने महाभोजमेकम् आयोजयिष्यति

एता परीक्षा श्व प्रभृति प्रारप्स्यन्ते जम्मकश्मीर सभा जम्मू कश्मीरे अक्तूबर मासस्य पञ्चविंशतिदिनाइकात् सचिवालय प्राशासनिका कार्यालयाश्च शीतकालात् जम्मूक्षेत्रे कार्य विधास्यन्ति वर्षे द्विवारमेतत् परिवर्तनं भवति सप्तचत्वारिंशदधिकैकशतवर्ष प्राचीनेयं परम्परा अस्ति महाराष्ट्रम्राजनीति महाराष्ट्रे भाजपा शिवसेना दलयोः सत्ताविवाद क्रमे भाजपा दलस्य वरिष्ठनेता महाराष्ट्र मुख्यमन्त्री देवेन्द्र फडणवीस शिवसेनाया वरिष्ठो नेता परिवहन मन्त्री दिवाकर राओते च अदय पृथक्तया राज्यपालं भगत सिंह कोश्यारिणम् अमिलताम् उभयो नेत्रो अन्सारि तत्र राजनीति संबद्धा न कापि परिचर्चा जाता मुम्बय्याम् ऑक्टोबर् मासस्य त्रिंशद् दिनाइके भाजपा दलाध्यक्ष्स्य अमितशाहस्य शिवसेनाध्यक्षस्य उद्धव ठाकरे वर्यस्य च मेलनानन्तरम् एव अस्य सत्ताविवादस्य उपशमनं भविष्यतीति संभाव्यते

अस्माकं वार्ताहरेण सूचितं यत् यम्नोत्र्या केदारनाथ धाम्नश्च कपाटा श्व पिधास्यन्ते